अफ़गानिस्तानं पाकिस्तानं सम्मुखीकरोति अथ च ऑस्ट्रेलियादलं न्यूजीलैण्डदलेन साकं क्रीडति प्रधानमन्त्री जी विंशति सम्मलिनम् प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना जीविंशति इति सम्मेलनस्य सदस्य देशानाम् आपद निवारणाय आधारभूतसंकल्पना सज्जीकरणाय अन्ताराष्ट्रियसड़घेऽस्मिन् सम्मेलनाय आग्रह कृत प्रधानमंत्रिणा नरेन्द्रमोदिना जापानदेशस्य ओसाकायां आयोज्यमानस्य जी विंशति इति शिखर सम्मेलनस्य अवसानदिवसे इंडोनेशिया ब्राजील तुर्की चेत्यादि देशानां राष्ट्रपतिभि साकं वैयक्तिकरूपेण मेलनं कृतम् श्री मोदिना एभि नेतृभि साकं पारस्परिकसम्बन्धदृढीकरणाय व्यापारनिवेशसहयोगवर्धनाय च विशिष्टचर्चा विहिता प्रधानमन्त्रिणा ऑस्ट्रेलियाया प्रधानमन्त्रिणा स्कॉट मॉरिसनवर्येण साकमपि वार्ताकृता यत्र क्रीडा खनन प्रौद्योगिकी रक्षा समुद्रसहयोगश् चेत्यादि विषयेष् अपि चर्चा विहिता अमितशाह गृहमन्त्रिणा अमितशाहेन अद्य आश्वासनं प्रदत्तं यत् राष्ट्रियापद्योचनबलम् इत्यस्य राज्यापद्योचनबलानि सुद्रढ़यित्म् अथ च तेषाम उन्नयनार्थं केन्द्रप्रशासनं पूर्णतोद्वशा साहाव्यमाचरिष्यति तेनोक्तं यत् संस्थेयं आगामिपञ्चवर्षेष् स्वकीयानि उपकरणाणि उन्नतयृतानि प्रापणार्थ स्वदेशी निर्माणार्थव्व रक्षान्संधानविकाससंघटनेन साकं सहयोगम आचरेता अमितशाहेनोक्तं यत् देशेऽस्मिन् विकसितानि उपकरणानि एव आवश्यकानि येन भारतम् आपद्योचनक्षेत्रे अग्रणी भवेत् गृहमन्त्री राज्यापद्योचनबलानां क्षमताविविर्धनस्य वार्षिकसम्मेलनं सम्बोधितवान् नवदेहल्यां सम्मेलनेऽस्मिन् होमगार्ड सिविलडिफेंस अग्निशमनसेवाविभागाश्चेति संस्था परामर्शयुता सन्ति सांख्यिकीमन्त्री सांख्यिकीकार्यक्रमकार्यान्वयनमन्त्रिणा रावइन्द्रजीतसिंहेनोक्तं यत् भारतीयपरिदृश्यस्य अनरूपाया सांख्यिकीप्रणाल्या आवश्यकता अस्ति यस्यां विश्वसनीया पारदर्शी च भवेत् अथ च तीव्रगत्या कार्यमाचरेत् ऐषमो वर्षस्य सांख्यिकी दिवसस्य विषय वर्तते सततविकासलक्ष्यम अद्य नव देहल्यां त्रयोदशे सांख्यिकीदिवसावसरे श्रीरावइन्द्रजीतसिंहेन सांख्यिकीविन्द्रि प्रार्थितं यत् तै प्रशासनस्य देशस्य च उपयोगाय विश्वसनीयानि तथ्यानि प्रदद्यू महिलासशक्तीकरण महिलाबालविकासमन्त्रालयेन राष्ट्रियमहिला सशक्तीकरणनीत्या प्रारूपं सज्जीकृतं महिलाबालविकासमंत्री स्मृति ईरानी ह्यो लोकसभायाम् प्रतिपादितवती यत् प्रारूपे अस्मिन् यादृशस्य समाजस्य कल्पना कृता अस्ति यस्मिन् महिलानां स्वकीया पूर्ण सामध्यानुसारेण विकासस्य अवसरा भवेय् अथ च ताभि प्रत्येकस्मिन् क्षेत्रे पुरूषै साकं समानत्वेन साहाय्यं विदद्यू श्रीमत्या स्मृतिईरानी इत्यनया उक्तं यत् प्रारूपेऽस्मिन् महिलानाम् आवश्यकतानुरूपं स्वास्थय खाद्यस्रक्षा पोषण शिक्षा शासन निर्णयकारीप्रक्रिया महिलानां विरूद्ध हिंसाचरण पर्यावरण जलवाय् परिवर्तन दृशेभ्य क्षेत्राणि प्राथम्येन सम्मिलानि सन्ति

क्रिक्ट्क्रीडा इंग्लैण्डदेश अद्य आयोज्यमाने द्वन्द्वव्यं महदत्साहेन दर्शकै दृश्यते यत्र प्रथमद्वन्द्वे अफ़गानिस्तानवृन्द पाकिस्तानं सम्मुखीकरोति तथैव आस्ट्रेलियादलं न्यूजीलैण्डदलेन साकं क्रीडति श्वो भारतं इण्ग्लैण्डदेशेन सह त्रिवादने क्रीडिष्यति